केन्द्रीयो गृहमन्त्री अमितशाह आश्वासितवान् यत् नागरिकता संशोधन विधेयकं संसदि अभ्युपगमिष्यति भाजपादलेन महाराष्ट्रविधानसभायै सपादोत्तरैकशत प्रत्याशिनां सूचि प्रख्यापिता मुख्यमन्त्री देवेन्द्रफडणवीस नागप्रीय दक्षिणपश्चिमीयासनात् योत्स्यति

राष्ट्रिय स्वास्थ्य प्राधिकरणेन द्वि दिवस व्याप्ययं कार्यक्रम आय्ष्मान् भारतमिति प्रधानमन्त्रि जन आरोग्य योजनाया वर्षैकपूर्तिम् उपलक्ष्य समायोजित आसीत्

प्रधानमन्त्री अद्यक्ष स्मृति प्रक्रमुद्राकन विमोचन समखि भारत स्टार्ट अप ग्रष्डि चर्त्रीज इत्याख्यस्य सचलदरभाषीय चरिष्णुतन्त्रस्यापि श्भारम्भं करिष्यति प्रधानमन्त्री अस्या योजनाया कतिपय लाभार्थिभि साकमपि सम्भाषयिष्यति राजनाथ रक्षामन्त्री राजनाथसिंह अद्य निजमन्त्रालयं प्रोदैरयत यत् स सैन्यभटानां लघ् लघ् आवश्यकता प्रति चापि दत्तावधानो भवेत् अद्य नवदिल्ल्यां रक्षालेखादिवसावसरे समायोजिते कार्यक्रमे उपस्थितान् जनान् सम्बोधयन् असौ न्यगदत् यत् रक्षा लेखा विभागेन देशस्य रक्षा वित्त संकल्पनायां व्ययादिष् च निशितदृष्टि निपात्यते अस्मिन्नवसरे अनेन पंचत्रिंशज्जना समूहाश्च रक्षामन्त्र उत्कृष्टता पुरस्कारेण सभाजिता

अद्य नवरात्रि पर्वण तृतीया पर्यन्तं मातु वैष्णव्या कृपाकांक्षिण लक्षाधिका श्रद्धालव मन्दिरं सम्प्राप्ता सन्ति उदन्तमिदं तत्रत्यै अधिकारिभि आकाशवाण्या साकं संजात सम्भाषणावसरे प्रतिपादितम्

देशो विदेशेष् च भारतीयराजदृतावासै भूरि कार्यक्रमा समायोजयिष्यन्ते प्रधानमन्त्री श्रीनरेन्द्रमोदी श्व अहमदाबादे साबरमती आश्रमे राष्ट्रपित्रे गान्धिने श्रद्धांजलीन् समर्पयिष्यति असौ आश्रमम् एकलप्रयोगाई प्लास्टिक मुक्तं विधातूं तत्र समायोजिते कार्यक्रमे अपि भागं भजिष्यति महात्मगान्धिन प्रमुख सन्देश आसीत् स्वच्छता एव ईश्वर सन्निध्य प्राप्ते अजिह्या राजपद्धतिरस्ति

प्रथमस्च्यां पर्वत एव विधायकत्वेन वर्तमाना द्विवपंचाशत् जनाश्चापि समाविशन्ति

भागलपुर गया कैमूर जनपदेषु सर्वाधिका एकविंशतिर्जना मृता सूच्यन्ते